याचिकाया वाश्रवणं पंच न्यायाधीशानां पीठेन करिष्यते

उच्चमाध्यमिक विद्यालया उद्घाटिता

पंच न्यायाधीशानां सम्विधानिक पीठेन याचिकेयं श्रोष्यते न्यायालयेन केन्द्राय जम्म्कश्मीर शासनाय चापि एतद्विषयिणी सूचना प्रख्यापितास्ति

तै प्रतिपादितं यत् ह्य येभ्य आरक्षि स्थात्र स्थानेभ्य प्रतिबन्धा अपाकृता आसन् तेष् उत्तर कश्मीरस्य हाजिन करीरी डांगीवाचा विलगाम क्षेत्रै समं दक्षिण कश्मीरस्य अनन्तनाग कुलग्राम त्राल शोपियां चेति क्षेत्राणि समाविशन्ति मध्य कश्मीरस्य येभ्य क्षत्रेभ्य प्रतिबन्धा अपाकृता तानि सिन्त निशात शेरगढी बीरवा चरारे शरीफ चेति अधिकारिभि निगद्यते यद येभ्य क्षेत्रेभ्य प्रतिबन्धा अपाकृता तत्र तत्र स्थिर दरभाषा संचाल्यन्ते अमितशाह सुरक्षा गृहमन्त्रिणा अमितशाहेन प्रोदीरितं यत् भारतं पंच ट्रिलियन डॉलर मूल्यात्मिकाम् अर्थव्यवस्थां विधात्ं देशस्य आन्तरिकी सुरक्षा व्यवस्था नूनमेव सुदृढा विधेयास्ति असौ अद्य नवदिल्ल्यां आरिक्ष अनुसन्धान विकास ब्यूरो इत्यस्य स्थापना दिवस समारोहे सदनं सम्बोधयति स्म गृहमन्त्रिणा ईरितं यत यावद् देश समाद्वानानां सम्मुखीकरण स्थितौ न प्राप्नेति तावत् लक्ष्याधिगमनं नैव सम्भवति

परन्तु केनापि देशेन द्स्साहस क्रियते चेत् तस्मै तस्योत्तर मुखभंजनकरं प्रदास्यते जम्मूकश्मीर आतंकि निगडनम् जम्मुकश्मीरे आरक्षिबलेन ह्यो बारामुलायां स्थानीयः आतंकी निगडीकृतोऽस्ति आरक्षि प्रवक्त्रा प्रत्यपादि यत् एकस्या सत्य सूचनाया समाधारे आरक्षिबलेन जैश ए मोहम्मद इति आतंकि गुल्मस्य इकबाल नाइको इत्याख्य आतंकी बारामुलाया देलिना क्षेत्रत निगडित असौ बारामुलाया पुरातन नगरस्य वास्तव्यो वर्तते तस्य सकाशात् आयुधान्यपि अधिगतानि सन्ति सर्वोच्चन्यायालय येचुरी सर्वोच्च न्यायालयेन अद्य सीपीआईएम् दलस्य महासचिव सीताराम येचुरी तस्य मित्रं प्राक्तनं विधायकं मोहम्मद युस्फ तारिगामिनं मेलितूं जम्मुकश्मीर गमनाय समनुमत मुख्य न्यायाधीशस्य रंजन गोगोई वर्यस्य आध्यक्ष्य युतेन पीठेन येच्री समादिष्ट यत् स यात्रावसरे केवलं नैजं मित्रमेव मिलेत् कथमपि राजनीति च न कुर्यादिति